ग़हमन्त्री अमितशाहः प्रदर्शनकारिणः कृषकान् सर्वकारेण सह वार्ताः कर्तः समामन्त्रयत्

भारतं कोरोना इति वैश्वकसंक्रमणं प्रति प्रवर्तमाने यूदधे निर्णायकस्तरे स्वास्थ्यमितिः षड्अष्ट दशमलव उत्तर त्रिनवतिमिता संवृत्ता भारतं ऑस्ट्रेलिया देशं च अन्तरा एकदिवसीय क्रिकेट सार्धा मालिकायाः द्वितीया सार्धा अद्य आयोक्ष्यते भारताय विजयः अत्यावश्यकः

भवन्तोऽपि अस्माभि सह सुरक्षाया उ ायत्रयस्य संकल ं स्वीक्वन्त् मुखावरंक सन्धारयन्त् सामाजिकदौर्य परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त्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

गहमन्त्री कषक ग़हमन्त्री अमितशाहः प्रदर्शनकारिणः कषकान सर्वकारेण सह वार्ताः कर्तः समामन्त्रयत ग्हमन्त्रिणा प्रदर्शनकारिणः कृषकान् प्रति निवेदनं क्र्वता प्रोक्तं यत् सर्वकारः वार्ताः कर्त् सज्जो वर्तते श्रीशाहेन वार्ताहराः ज्ञापिताः यत् कृषिमन्त्रिणा कृषकाः दिसम्बरमासस्य तृतीयदिवसे वार्तायै समाहताः सन्ति तेनोक्तं यत् सर्वकारः कृषकैः सह तेषां समस्या याचनयोः चर्चा कर्त् सज्जः अस्ति पीएम यात्रा प्रधानमन्त्री नरेन्द्रमोदी कोरोना इति वैश्विक संक्रमणस्य सुच्यौषधविकास निर्माण प्रक्रियां समीक्षित्ं स्वीय नगरत्रयस्य यात्राक्रमं हयः सम दयत् एणे नगरे प्रधानमन्त्री विश्वस्य ब्रहतमस्य कोरोना सूच्यौषध निर्मात समवायस्य अवलोकनं अकरोत्

इतः प्राक् श्रीमोदी अहमदाबादस्थ जायडस बायोटेक् शार्क इति स्थलम् अपि गतवान् मध्यानि श्रीमोदी हैदराबादस्थ भारत बायोटेक् इत्यत्र अगि गतवान् आसीत् प्रधानमन्त्री कार्यालयानुसारि भारतं कोरोना संक्रमणं विरुध्य संघर्षे निर्णायकस्तरे युध्यति अप्रि च प्रधानमंत्रिणः इयं यात्रा महत्व र्णा सेत्स्यति